ग़हमन्त्रालयेनोक्तं यत् दिल्ल्या हिंसाप्रभावितेष् पूर्वोत्तरक्षेत्रेष् स्रक्षाबलानि सन्नद्धानि वर्तन्ते स्थिति नियन्त्रणाधीना भारतेन कोरोनाविषाण्यस्तं चीनदेशाय आपात्साहाय्यं प्रदतम् द्वादशोत्तरैकशतं भारतीया वैदेशिकाश्च जना भारतं सम्प्राप्ता उपान्त्यचक्रे संप्रविष्टं भारतीयं महिलाक्रिकेटदलम पराजिता न्यूजीलैण्डक्रीडका भारतम्यामांर देशौ भारतम्यामां देशाभ्याम् अदय आधारभूतसंरचनायै ऊर्जसे संचाराय स्वास्थ्याय किञ्च विभिन्नक्षेत्रेभ्य दशसन्धय प्रमाणीकृता प्रधानमन्त्रणिा श्रीनरेन्द्र मोदिना म्यामांदेशस्य राष्ट्रपतिना ऊ विन मिन्तवर्येण अद्य मन्त्रणानन्तरम् एते सन्धय हस्ताक्षरिता म्यामांदेशीयो राष्ट्रपति ऊ विन मिन्तवर्य चत्र्दिवसीययात्रायै हय सायं नवदिल्ल्यां सम्प्राप्तवान् अद्य प्रात राष्ट्रपतिभवने तस्मै पारम्परिको औपचारिको भव्य स्वागतीकार्यक्रम समन्ष्टित असौ राष्ट्रपित्रे प्ष्पाञ्जल्यर्पणाय राजघट्टे अपि गतवान् दिल्लीहिंसा दिल्ल्यारक्षिबलेनोक्तं यत् पूर्वोत्तरदिल्लीक्षेत्रे स्थिति नियन्त्रणाधीना वर्तते विगतेष् दिवसेष् हिंसायां मृतकानां संख्या अष्टाविंशति अभवत् हिंसालिप्तेष् शताधिका उपद्रविण निगडीकृतास्सन्ति प्रभावितक्षेत्रेष् पर्याप्ता सुरक्षाभटा सन्नदधा वर्तन्ते दिल्ल्यारक्षिभि साहाय्यार्थ सम्पर्कार्थ च द्रभाषीयसंख्या प्रसारिता तदित्थं दवे दवे अष्ट दवे नव त्रि चत्र् अपरा च द्रभाषसंख्या इत्थं वर्तते दवे दवे अष्ट दवे नव त्रि पञ्च इति

प्रधानमन्त्रिणा श्रीनरेन्द्रमोदिना हयो दिल्ल्या हिंसाग्रस्ते पूर्वोत्तरक्षेत्र स्थिते समीक्षा कृता राष्ट्रियस्रक्षापरामर्शकेण अजीतडोभालेन अपि हय प्रभावितक्षेत्राणां निरीक्षणं क़तमासीत्

प्रतिनिधिमण्डलेन दिल्ल्या पूर्वोत्तरक्षेत्रे घटिते हिंसाप्रकरणे राष्ट्रपतये अवगति प्रतिवेदनं सपर्षितम

तदनन्तरं पत्रकारै सह वार्तायां सोनियागांधी दिल्लीहिंसायै केन्द्रप्रशासनेन सह दिल्ल्या मुख्यमन्त्री अरविन्दकेजरीवाल चापि उत्तरदायिनौ कट्वालोचिवती